महावीर जयन्त्योत्वसे अद्य राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च देशवासिनो वर्धापिता

य्गपदेव श्रीमता मोदिना दल कार्यकर्तार निवेदिता यत् प्रत्येकमपि कार्यकर्त्ता प्रधानमन्त्रि अन्दान पटले चत्वारिंशत् जनान् साहाय्य राशि प्रदानाय सम्प्रेरयत् इति अत्रावसरे अमूना डॉक्टर श्यामा प्रसाद मूखर्जी सन्निभाः भाजपादलस्य समर्पित मनाः पूर्व नेतारः स्मृता तेनोक्तं यत् एतै दलाय विहितेन महत्त्वातिशायिनेन योगदानेनैवाद्य दलमिदं देशसेवायै म्क्तमनसा संलग्नमस्ति प्रधानमन्त्री कोरोना प्रधानमन्त्रिणा नरेन्द्रमोदिना देशवासिनो वर्धापिता

ध्येयमस्ति यत् विगते निशीथे नववादने नव मिनट् पर्यन्तं अशेषमिप राष्ट्रं दीप प्रकाश प्ञ्जं अरचयत् सर्वमिदं प्रधानमन्त्रिण मात्रमेकं समाहवानम् अन्सृत्यैव साक्षादभूतम् कोरोनांधकार कालेऽस्मिन् प्रकाशप्ञ्जबलेन जनमनांसि रञ्जयित्ं उत्साहवर्धनार्थ च प्रधानमन्त्रिणा दीप प्रज्वालनार्थ देशवासिनो निवेदिता आसन् समाहवानस्य सफलतायै प्रधानमन्त्रिणा जनान् प्रति धन्यवादा प्रकटिता

अध्नावधि आहत्य देशे कोरोना पीडितानां संख्या सप्तषष्ट्यधिक चत्ः सहस्रमिता संवृत्तास्ति स्वास्थ्य मन्त्रालयानुसारि उक्तेष् दवि नवत्युत्तर दवि शतं कोरोना प्रपीडिताः स्वस्था भूत्वा गृहं निवर्तिता यद्यपि नवाधिकशतं जना मृत्युम्पगता एतदतिरिच्य भारतीयायुर्विज्ञानपरिषद व्यज्ञापयत् यत् अद्यावधि देशे प्राय सार्धनवाशीर्तिजनानां कोरोना परीक्षणं विहितम् तंत्रैव संस्थानमिदं कोरोना विषाणो नियमनाय नैकविधान् पदक्रमान् उत्थापयति

अत्र क्रमे नागर विमानन मन्त्रालयस्य जन जीवनवाहिनी उड्डयन सेवापि सम्मिलितास्ति

अवसरेऽस्मिन् राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च देशवासिनो वर्धापिता राष्ट्रपति रामनाथकोविन्द ट्वीट् सन्देश द्वारा न्यगादीद् यत् भगवत महावीरस्य सत्याहिंसान्विता शिक्षा अद्यापि प्रासंगिकतां भजते